हरियाणा महाराष्ट्र राज्ययोः विधानसभेय निर्वाचनेभ्यः प्रचारः चरमोत्कर्षम् आरोहति

अस्य अभियानस्य उद्देश्यं विभिन्न राज्यानां जनेषु परस्पर भाषणेन विभिन्न संस्कृतनाम् अभिज्ञानं वर्तते श्रीमोदीवर्यः मामल्लपुरमतः आगत्य दिल्ल्यां तस्य आगामि कार्यक्रमाणां विषये ट्वीट माध्यमेन सूचनां प्रदत्तवान् डच नीदरलैंड्सस्य नृपः विलेम अलेक्जेंडरः राज्ञी मैक्सिमा च पञ्च दिवसीय यात्रार्थं भारते आगमिष्यतः अत्र आगत्य द्विपक्षीयार्थिक राजनीतिक सहयोग वर्धनाय देशस्य शीर्ष नेतत्वेन सह उभौ उपवेशनं करिष्यतः

अमितशाहः गृहमन्त्रिणा अमितशाहेनोक्त यत् आतङ्वाद नक्सल हिंसाभ्यां महत्तरं मानवाधिकारोल्लङ्घनम् नास्ति अन्यत् अमुना निगदितं यत् चत्वारिंशत् सहस्राधिकजनाः कश्मीर आतङ्वादकारणात् प्राणान् अत्यजन् गृहमन्त्री अमितशाहः गतदिने नवदिल्ल्यां राष्ट्रियमानवाधिकारायोगस्य षट्विंशतिः स्थापनादिवससमारोहं सम्बोधयति स्म जम्मूकश्मीरे आक्रमणम् जम्मुकश्मीरस्य श्रीनगरे गतसायं दरापादिते विस्फोट न्यूनान्यूनम् अष्टौ जनाः व्रणिताः स्रोतोभिः सुचितं यत् सन्दिग्धा तड्कवादिना हरिसिंहमार्गस्थे आपणं प्रतो वस्फोटः कृतः

पश्चिमबंगालहिंसा पथ्चिमबङ्गालस्य मुर्शिदाबादजनपदे जनत्रयस्य हत्या प्रकरणे आरक्षिभिः जनद्वयं निगडितम् केन्द्रीयान्वीक्षणाभिकरणस्य दलम् घटनास्थलमुपेत्य गतदिने अन्वेषणम् प्रारभत् भाजपादलं पथ्चिमबङ्गालस्य उपराज्यपालः जगदीपधनखडश्च प्रकरणेऽस्मिन् ममताबनर्जी प्रशासनम् कट्वालोचितवन्तौ राज्यरक्षिबलेन प्रोक्त यत् पारिवारिकसदस्यानां हत्या राजनीतिप्रेरिता नास्ति हत्या प्रकरणमिद पारस्पारिक वैमनस्य कारणेन सञ्जातम् भाजपादलस्य प्रदेशाध्यक्षः दिलीपघोषः प्रावोचत् यत् तृणमूल कांप्रेसदलं राज्ये विधिव्यवस्था प्रवर्तने अक्षमं वर्तते अम्ना विषयेऽस्मिन् सम्भाषणाय राष्ट्रपतये रामनाथकोविन्दाय गृहमन्त्रिणे अमितशाहाय च अध्यर्थना कृतास्ति नक्सलिन छत्तीसगढस्य दन्तेवाडा जनपदे प्राशासनिकाधिकारिद्वयम् अथ च राजमार्ग निर्मातृ समवायस्य एकः कर्मचारी नक्सलवादिभिः मोचिताः आरक्षिणाम् अन्सारेण एतेषां मुक्तौ ग्रामीणजनैः महत्तवपूर्णा भूमिका निर्व्यूढा नक्सलवादिभिः समेऽपि पोटली ग्रामात् बन्दीकृताः आसन् तत्र प्रधानमंत्री ग्रामसडकयोजनान्तर्गतं निर्माणकार्यं प्रवर्तते स्म बैटमिण्टन नीदरलैण्डे डच मुक्त ओपन सुपर हंड्रेड बैडमिण्टन इति स्पर्धायाः अन्तिमे चक्रे अद्य भारतस्य लक्ष्यसेनः जापानस्य युस्के ओनोडेरेण सह स्पर्धिष्यति गतदिने लक्ष्यः स्वीडनदेशस्य फेलिक्स ब्यूस्टेड्स पराजित्य पुरुष एकल वर्गस्य निर्णायक चक्रे प्रविष्टः मुष्टामुष्टि महिलानां विश्व मुष्टामुष्टिस्पर्धायां मञ्जू रानी अद्य निर्णायक चक्रे क्रीडिष्यति